प्रधानमन्त्री भारतेन त्रिंशत्युत्तर द्वि सहस्रतम वर्षपर्यन्तं षष्टि लक्षोत्तर द्वि कोटि हैक्टेयर मरूस्थलीम् भूमिं उर्वरतायोग्यं कर्त् लक्ष्यमेक विनिर्धारितम् प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य प्रेटर नोएडायां मरूस्थलीं रोद्रं संयुक्तराष्ट्र सन्धौ समाविष्ट देशानां चतुर्दशे सम्मेलने इद भणितमस्ति प्रधानमन्त्रिणोक्तं यत् विश्वस्य अधिकतमदेशा समस्येयं सम्मुखीकूर्वन्ति स्वीये सम्बोधने प्रधानमन्त्रिणा ऋत् परिवर्तनं जैव वैविध्यं उर्वरता हीनता सदृक्समस्यानाम् अपाकरणार्थं सर्वेषां सहयोगावश्यकता सबलं प्रतिपादिता तेन भणितं यत् उपग्रह अन्तरिक्ष प्रविधि द्वारा एतादृक् कार्यक्रमेष् भारत देश मित्र देशानां सहायतामपि करिष्यति प्रकाश जावडेकर सम्मेलनं सम्बोधयन् पर्यावरण मन्त्री प्रकाश जावडेकर प्रोक्तवान् यत् मरूस्थलीकरण समस्याम् अपाकर्त् राष्ट्रिय प्रयासानाम् अपेक्षा विद्यते कॉप चतुर्दश सम्मेलनं सितम्बर द्वितीयाद् प्रेटर नोएडायां प्रचलति मरूस्थलीकरणं रोद्रं संयुक्तराष्ट्र सन्धे कार्यकारि सचिवेन इब्राहिम थिआवेन विश्वास प्रकटित यत् सर्वे देशा असमानता अस्रक्षा भावं परित्यज्य सहयोग ं कुर्य चेत् जीवनाय भूमे स्थायि विकास लक्ष्यं प्राप्तुं शक्यते शेखावत केन्द्रीय जलशक्ति मन्त्रिणा गजेन्द्र सिंह शेखावतेन प्रतिपादितं यत् मोदी प्रशासनेन गत पञ्च वर्षेष् स्व कार्येभ्य जनेष् शासनं प्रति विश्वास जनित जयपुरे समायोजिते एकस्मिन् वार्ताहर सम्मेलने अमुनोक्त यत् प्रशासनं चतुर्विंशत्युत्तर द्वि सहस्रतम वर्षपर्यन्तं प्रत्येकस्मिन् गृहे पेयजलम् उपलब्धियत् कृतसंकल्पं विद्यते

आशूरा ए मोहर्रम पूर्व सन्ध्यायां स्वीये सन्देशे तेनोक्तं यत् हजरत इमाम हुसैन तत्सहयोगिन च सत्य न्याय मूल्यान् संरक्षित् जीवनं समर्पितवन्त

नवदिल्याम् अद्य भारत चीनयोर्मध्ये समन्ष्ठितं रणनीतिकार्थिक उपवेशनं सम्बोधयता नीत्यायोगाध्यक्षेण डॉक्टर राजीव क्मारेण प्रोदितं यत् देशयोर्मध्ये द्विपक्षीयं व्यापारम् अतोऽपि समेधित् भारतं प्रयत्नरतमस्ति

राष्ट्रपति राष्ट्रपति श्रीरामनाथ कोविन्द त्रयाणां देशानां यात्राक्रमेडद्य आइसलैण्डं सम्प्राप्तवान स्वीय प्रवासावधौ असौ आइसलैण्ड राष्टपतिना समं द्विपाक्षिक वातां विधास्यति अथ पारस्परिक सहयोग सम्बद्धानि सन्धिपत्राणि हस्ताक्षरै प्रमाणयिष्यति पर्यावरण विषयमाधृत्य आइसलैण्ड विश्वविद्यालये राष्ट्रपते व्याख्यान कार्यक्रमोपि वर्तते अमितशाह केन्द्रीय गृहमन्त्रिणा भाजपा अध्यक्षेण अमित शाहेनोक्तं यत् पूर्वोत्तर लोकतान्त्रिक संयुते नेडा इत्यस्य स्थापनोदेश्यम् एन डी ए प्रशासनं ग्राम स्तरं प्रति नयनं विद्यते

अम्नोक्त यत् जगति शान्ति स्थिरता सन्धारण दिशि अग्रद्तत्वेन देशाभ्यां पदक्रमा विधीयन्ते उपराष्ट्रपति अद्य नवदिल्यां फ्रांस सांसदानां शिष्टमण्डलै समं सम्वादमाचरति स्म भारतस्य स्मार्ट सिटी निर्माणाभियाने फ्रांसस्य सहयोगनिर्णय मवलम्ब्य फ्रांसदेशं प्रति उपराष्ट्रपति आभारं न्यवेदयत्